तमिलनाडौ नेतृणां चयनम्द्दिश्य डीएमकेदलस्य नवनिर्वाचित विधायकानां मन्द्रणा

बीसीआई इति क्रिकेट्मण्डलेन आईपीएल्क्रीडा अनिश्चितकालाय स्थगिता

एतदर्थ निवेदयते यत असवाधनतां मा व्यवहरन्त् सममेव पञ्चचत्वारिशत वर्षतो वयोधिकैः सर्वैः जनैः सूच्यौषधं स्वीकरणीयम अवन्तः भवत्यश्च स्रक्षायाः उपायत्रयस्य सङ्कल्पं स्वीकृत्य स्रक्षिताः भवन्त् म्खनासिकावरकं सन्धारयन्तु दैहिकदौर्यं परिपालयन्तु पाणिपादं च यथासमयं प्रक्षालयन्त्

अस्मिन े सम्मेलने नैके महत्वपूर्णनिर्णयाः स्वीकृताः

राष्ट्रिय पात्रतापरीक्षा प्रवेश परीक्षा नीट इति तथा च स्नातकोत्तर परीक्षाः चतुभ्र्यः मासेभ्यः स्थगिताः एतेन निर्णयेन कोविडसम्बन्धिकार्येभ्यः प्रशिक्षितानां चिकित्सानाम उपलब्धता स्निश्चिता भविष्यति इमाः परीक्षाः अगस्तमासस्य एकत्रिंशत्दिनाङ्कात प्राक न भविष्यन्ति परीक्षायाः तिथीनां घोषणानन्तरं विद्यार्थिभ्यः सज्जतायै न्यान्तिन्यूनम मासस्य समयः प्रदास्यते एमबीबीएस अंतिम वर्षस्य विद्यार्थिनां सेवानाम उपयोगः द्रभाषपरामर्शन समं सङ्क्रमणस्य अल्पलक्षणानां चिकित्सानां निरीक्षणसम्बन्धसेवानां कृते करिष्यते केन्द्रप्रशासनम केंद्रप्रशासनेन एकः महत्वपूर्णः निर्णयः विहितः रेमडेसिविरसूचयौषधम एपीआईइति चिकित्साऑक्सीजनम ाऑक्सीजनसंरक्षकाणि क्रायोजेनिकभण्डारकाणि कोविडसूच्यौषधैः सहितानां चिकित्सा सामग्रीणाम आयातेष् अन्ताराष्ट्रियवस्त्सेवाकरः न स्वीकरिष्यते एतेषां वस्तूनां वितरणाय इयं च्युतिः जूनमासस्य त्रिंशत दिनाङ्कं यावत भभविष्यति एतस्मात ापूर्व केन्द्रप्रशासनेन एतासां चिकित्सा सामग्रीणाम उपरि स्वास्थ्य उपकरः अपसारितः अनया च्युत्याचिकित्सासामग्रीणाम आयातः विना अन्ताराष्ट्रियवस्त्सेवाकरदानेन भविष्यति राज्यसर्वकाराः आयातकेभ्यः एताः स्विधाः दात्ं प्राधिकरणं नियोक्त्ं कथिताः सन्ति

उच्चशिक्षासचिवः अमितखरे संस्थानां प्रम्खेभ्यः लिखिते पत्रे सर्वान भौतिकपरीक्षाः स्थगित्ं कथितवान ऑनलाइन परीक्षाः निर्धारित कार्यक्रमान्सारं भविष्यन्ति पत्रे इदमपि कथितम अस्ति यत जूनमासस्य प्रथमे सप्ताहे अस्य निर्णयस्य समीक्षा करिष्यते सर्वाः संस्थाः अर्हजनान ासूच्यौषधीकरणाय प्रोत्साहितान क्र्र्य्ः तथा च अस्मिन ासम्बन्धे यथासम्भवं साहाय्यं उपलब्धं कारयिष्यते केन्द्रशासिते प्रदेशे प्रदद्दचेरीनगरे भारतीय जनता पार्टीति दलस्य प्रभारी निर्मल क्मार सुराणा प्रत्यपादयत ायत ायल समन्वित प्रशासनस्य सहभाग भविष्यति प्दद्दचेर्या प्रथमं तावत भारतीय जनता पार्टीति दलं प्रशासने सम्मिलितो भविष्यति अवधेयं यत प्द्दचेर्या एनडीएदलेन त्रिंशत ासदस्यानां विधानसभायां बहमतं अधिगतम ाअस्ति एनआर कांग्रेसदलेन दश आसनानि जितानि भाजपादलेन च षट् आसनानि प्राप्तानि सन्ति अपरत्र तमिलनाडौ डीएमकेदलं नवनिर्वाचितानां विधायकानां मन्त्रणां करिष्यति दलप्रम्खस्य एम के स्टालिन एत्यस्य चयनं विधायकदलनेतृत्वेन भविष्यति

तत्रैव एआईएडीएमकेदलनेतत्वयूतेन राष्ट्रिय जनतांत्रिकगठबंधनेन पंचसप्तति आसनानि अधिगतानि सन्ति

मुख्यमंत्री ट्वीट सन्देशे अब्रवीत यत मन्त्रिभि अधिकारिभिश्च समं विहिते उपवेशने अयं निर्णय कृत राज्य पिधानकाले टीकाकरण केंद्राणि बैंक आवश्यक सेवाश्य यथावत प्रवर्तयिष्यन्ते दिशानिर्देशानुसारं प्राशासनिक कार्यालया सार्वजनिक निगमा सकलानि निजि व्यापारिक प्रतिष्ठानानि पिहिता स्थास्यन्ति आवश्कवस्तूनां हट्टकानि प्रात सप्तवादनात ज्नव वादनं यावत उदघाटयिष्यन्ते विवाह समारोहेष् केवलं पंचाशत ाजनानां उपस्थिति अनुमतास्ति अंतिमसंस्कारे च विंशतिजना एव सम्मिलिता भविष्यन्ति

नेतृभ्यां कोरोना विषयकं समाहवानं आधृत्य व्यापक विचार विमर्श साधित अत्रांतरे सूच्यौषधस्य उत्पादन क्षमता आपूर्ति श्रृंखलायाश्च विस्तारे विशेषरूपेण चर्चा सम्पन्ना एतदतिरिच्य हिंद प्रशांत क्षेत्रे जलवाय् परिवर्तने म्यांमाप्रकरणे चापि विमर्श विहित डॉक्टर जयशंकरेण कथितं यत अस्यांदृष्करस्थितौ अमेरिकादेशन भारताय ऑक्सीजन रेमडेसिविर इत्यादीना चिकित्सासौविध्यानां आपूर्ति कृता एतदर्थ भारतपक्षतः अमेरिकां प्रति धन्यवादं व्याहरामि

क्रीडकचत्ष्टयं कोरोनासंक्रमितं जातम इति ध्यात्वा निर्णय क्रिकेट् क्रीडकेष् कोरोनासंक्रमणस्य प्रकोपं निध्याय प्रवर्तमानाया आईपीएल क्रिकेट प्रतियोगिताया स्थगनस्य उद्घोषणा कृतास्ति आईपीएल कार्यकारि परिषद अथ भारतीय क्रिकेट कंट्रोल बोर्ड इति मण्डलेन आपदपवेशने समाचरिते सर्वसम्मत्या निर्णयोयं विहित एकस्मिन वक्तव्ये आईपीएल प्रत्यपादयत यत क्रीडकान समेत्य सर्वेषां पक्षाणां हितं ध्यात्वा अयं निर्णय कृत अस्ति अवधेयं यत देशे महामार्या दवितीयं तरंगानन्तरं आईपीएल प्रतियोगिताया आयोजनं अवलम्ब्य आलोचना भवति स्म इति वार्ता